केन्द्रीय कृषि मन्त्रिणा नरेन्द्र सिंह तोमरेण आशा प्रकटिता यत् कृषिवला सकारात्मकतां विधाय आन्दोलनं समा यिष्यन्ते प्रधानमन्त्रिणा मोदिना स्थष्टीक़तं यत् कोविड नाइन्टीन इति वैश्विक संक्रमणावधौ अप्रि भारते वैश्विक निवेश मानांक स्तरं यावत् अधिगत ऐषमो भारतीय प्रौद्यौगिक संस्थानिकं शिखर सम्मेलने सम्बोधयन् आसीत् श्रीमोदी कोविड नाइन्टीन इति वैश्विक संक्रमणं विरुध्य भारतं अनारतं प्रर्णतोभावेन प्रयतते कोरोना संक्रमण प्रतिरोधी वीराणां साहसिक प्रयासै संक्रमण प्रत्यवाप्तिमिति शुन्यं दवे दशमलवोत्तर चत्र्नवति प्रतिशतं संवृत्ता

झारखंड राज्यं वस्तु सेवा करात् समुद्धजात राजस्व अध्यचितिं न्यूनीकर्त् देशस्य तेष् अष्टाविंशति राज्येष् सम्मिलितम् येष् एतदर्थ विकल् एकम् इति व्यवस्था प्रवर्तिता अस्ति अक्तूबर मासस्य त्रयोविंशति दिनांकादारभ्य देशस्य अष्टाविंशति राज्येष् त्रिष् विधानसभा संवलितेष् केन्द्रशासित प्रदेशेष् च प्रवर्तिता अस्ति कोविड आपनिंग प्रिया श्रोतार कोविड नाइन्टीन इति वैश्विक संक्रमणं विरुध्य राष्ट्रू ऐक्यभावनया यूध्यते

यतोहि कोरोना प्रतिरोधी नियमपालनमेव क्शाग्रब्द्धि परिचायकम्

केन्द्रीय कृषि मन्त्रिणा नरेन्द्र सिंह तोमरो विश्वासान्वितो दृश्यते यत् कृषका सकारात्मका सन् स्वीयान्दोलनं समाप्स्यन्ति इति कृषक कल्याणाय प्रशासनीयां प्रतिबद्धतां पुनः स्मारयता केन्द्रीयो कृषि मन्त्री समूदीरयत् यत् तेन कृषक प्रतिनिधय प्रार्थिता यत् ते तान् बिन्दून् उल्लेखयन्त् येष् कृषक प्रति निधय विवादास् दत्वेन प्रख्या यन्ति तेन सबलं प्रति ादितं यत् न्यूनतम समर्थन मूल्य व्यवस्था यथावस्थमेव प्रवर्तिता स्थास्यति अत कृषका न खल् कथंकारम विषयेऽस्मिन् चिन्तां आधादयन्त् अवधेयास् दं वर्तते यत् कृषक प्रतिनिधय अभिनव कृषि कृषक विधिष् प्रश्नान् सम्त्था यन्तः सन्ति प्रशासनस्य प्रतिनिधिभि तानि सांवैधानिक प्रावधानानि उद्बोधितानि यान्यालक्ष्य केन्द्रप्रशासनं इमा एतान् विधीन् विनिर्मितवत्

पीएम आईआईटी सम्मिट प्रधानमन्त्री नरेन्द्रमोदी प्रत्य ादयत् यत् कोविड नाइन्टीन इति वैश्विक महामार्यावधौ भारतेन अभूतपुर्वो वैदेशिक निवेश अधिप्राप्त अपि च अस्य अत्यधिभाग प्रौद्योगिक क्षेत्रे समभवत् प्रधानमन्त्री सबलं प्रत्य ादयत् यत् अनेन स्थष्टीभवति यत् अखिलम विश्वं भारतं विश्वासरुपेण प्रभावशाली सहयोगित्वेन अवलोकयति ह्य ऐषम भारतीय प्रौद्योगिक संस्थानिकं शिखर सम्मेलनं सम्बोधयन् अवादीत् यत् तदीयं प्रशासनं विज्ञान प्रौद्यौगिक विदये संवर्धयित् ़्र्णतोदृशा वर्तते कटिबदधम्

श्रीमोदी स्थष्ट्यकरोत् यत् न खल किमप्ति क्षेत्रं रिष्कार दृशा अस्गृष्टम् अस्ति असौ प्रशासन द्वारा विभिन्नेष् क्षेत्रेष् महत्व र्ण रिष्कारान् समूल्लेखयत् प्रधानमन्त्रिणा अभाणीत् यत् सद्यस्तनीया आस्माकीना कृतकार्यकला ा भाविजीवनं निर्मास्यन्ति

देशे सक्रिय प्रकरणानि श्यामश्चेत् नवाशीत्यधिक षड् शताधिक नव सहस्राधिक चत्र्लक्ष संख्याकानि प्रकरणानि वर्तन्ते कोरोना संक्रमण प्रतिरोधी वीराणां प्रयासेन प्रत्यवाप्तिमिति शून्यं द वे दशमलवोतर चत्र्नवति प्रतिशतं यावत् विवर्धिता प्राय नवति लक्षाधिका स्वस्थीभूता

सर्वेष् अष्टाविंशति राज्येष् त्रिष् विधानसभायुक्तेष् केन्द्रशासितप्रदेशेष् अयं निर्णय प्रवर्तितोऽस्ति अवधेयास् दं वर्तते यत् वस्त सेवाकर व्यवस्थान्तर्गत अपिचितिं प्रयित् विशेष ऋण सौविध्य दवारा नवाशीत्यधिक षङ्शतोत्तर एक सहस्रकोटि रुप्यकाणि प्रदास्यन्ते इति

क्रिकेट ऑस्ट्रेलिया भारतं च अन्तरेण तिसृणां विंशति प्रतिविंशति स् र्धामालिकाया कैनबरा क्रीडांगणे समायोजिता प्रथमास् र्धा हय भारतेन एकादश धावनांकै विजिता भारतेन ऑस्ट्रेलिया दलाय द्वि षष्ट्यूतरैक शतं धावनांकानां लक्ष्यं विनिर्धारितम् आसीत् लक्ष्यम् अनुसरता ऑस्ट्रेलिया दलस्य प्रारम्भ कर्तारौ यद्यपि किञ्चिद् भव्यप्रदर्शन रां क्रीडां प्रदर्शितवन्तौ तथापि भारतीय तीक्ष्ण कन्द्रक क्षे कर्तणां र सर्वम ऑस्ट्रेलिया दलं राजयम्खं प्राप्तवत् भारतीय कन्द्रक क्षे कर्तृष् चहल नटराजन् इत्येतौ भव्यप्रदर्शनं विहितवन्तौ अवधेयास दं वर्तते यत् भारतम् अन्तिमैकदिवसीय स्पर्धा विजित्य आत्मविश्वास रिपूरितं सत् अस्यां प्रथमायां विशति प्रतिविंशति स्थार्धायां अवतरत् आसीत्